झारखण्डे विधानसभा निर्वाचनानां पश्चम चरणात्मकं मतदानं अद्य सम्पन्नतां गतम् असमस्य मुख्यमन्त्री ब्रूते यत् नागरिकता संशोधन विधिं विरुद्धय प्रदर्शना कुर्वतां संस्थानानां प्रमुखै सार्धं प्रशासनं संवचादम् आचरिष्यति निष्कासित भाजपादलीय विधायक उन्नाव बलात्कोरे संलिप्त कुलदीपसिंह सेंगर आजीवनं कारावासदण्डेन दण्डित प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी प्रत्यपादयद् यत् भारतं पञ्च खर्बुद डॉलर मितान्वितं अर्थव्यवस्था निर्माणं उद्दिश्य प्रशासनेन अनेके महत्वास्पदा परिष्कारा विहिता प्रधानमन्त्री अद्य नवदिल्यां समायोजितं एसोचैम इत्याख्यं वार्षिक सम्मेलनं सम्बोधयति स्म

असमम् असमस्य मुख्यमन्त्री सर्वानन्द सोनोवाल ब्रते यत् नागरिकता संशोधन विधिं विरुद्धय प्रदर्शना कुर्वता संस्थानानां प्रमुखै सार्थं प्रशासनं संवचादम् आवरिष्यति

उपराष्ट्रपति उपराष्ट्रपति एम् वेंकैया नायड़ू प्रावोचद् यत् राष्ट्रहितं निध्यायैव जनै प्रदर्शनम् कर्तव्यम् हिंस्र प्रदर्शनम् अमुना अनुचितम् प्रख्यापितम् उपराष्ट्रपति अद्य नवदिल्यां पुस्तक विमोचनावसरे सम्भाषते स्म

जावडेकर पर्यावरणमन्त्री प्रकाशजावडेकर न्यगादीद् यत् पेरिस सन्धि अनुगुणं भारतं कार्बन उत्सर्जनस्य लक्ष्यं द्र्तगत्या प्राप्यमाणेष् देशेष् प्रम्ख देशो विद्यते अद्य नवदिल्यां वार्ताहरै समं सम्भाषमाण जावडेकर प्रत्यपादयद् यत् जलवाय्परिवर्तनं न्यूनीकरणार्थ पर्यावरणस्य संरक्षार्थ च भारतेन विहिता प्रयासा संयुक्त राष्ट्र कन्वेंशन इत्यस्य पञ्चविंशे अधिवेशने भृशं प्रशंसिता